वस्तु सेवाकर प्रवर्तनमालक्ष्य भाजपा शासन विहीन राज्यै सार्धं वस्तु सेवाकर प्रवर्तनमालक्ष्य भेदभावारोप वित्तमन्त्रिणा निराकृत

राष्ट्रपति राष्ट्रपति श्रीरामनाथकोविन्द देशे एतद्वर्षीयं नागरिकताऽधिनियम संशोधन विधेयकं प्रवर्तयित्ं स्वीयान्मतिं प्रदत्तवान् आधिकारिक सूचनानुसारि विज्ञातं यत् विधेयकमिदं गतदिवसे आधाकारिक राजपत्रे प्रकाशनानन्तरं प्रभावमापन्नम्

असमराज्यम मुख्यमन्त्री असमस्य मुख्यमन्त्रिणा राज्यवासिनो समाधासिता प्रोक्त च नागरिकताऽधिनियम संशोधन विधेयकमधिकृत्य चिन्ता मास्त् तेनोक्तं यत् असमसन्धे ष्रिंख्याकं धारानुग्णं जनेभ्य राजनीति भाषागत सांस्कृतिक भूमिगत अधिकाराणां संवैधानिक सुरक्षां समुपलम्भयित्ं प्रशासनं कृत संकल्पमस्ति श्रीमता सोनोवालेन न्याहृतं यत् केचन द्राग्रह समीहमाना जना विधेयक प्रसंगे मिथ्या प्रचार कुर्वन्ति राज्ये शान्ति स्थिरता च विनष्ट जनान् दृष्प्रभावयन्ति ध्येयमस्ति यत् नागरिकता संशोधन विधेयकमवलम्ब्य राजस्य विभिन्नस्थलेष् प्रदर्शनानि प्रवर्तन्ते स्थितिं नियन्त्रित् संचेतना प्रसारिताऽस्ति तत्र शिक्षा संस्थानानि विहितानि सन्ति

कार्यक्रम नवदिल्लीस्थे प्रवासि भारतीय केन्द्रे समायोक्ष्यते प्रथमं तावत् एतत् संवादद्वयस्य समायोजनं सार्थं विधीयते समानं चास्ति संवादयो विषय कार्यक्रमे भारत प्रशान्त क्षेत्रम् इति विषयमवलम्ब्य सम्बद्ध देशै सार्धं सम्बन्धं दृढीकरणार्थं देशानां विकासाय च परिचर्चा विधास्यते राज्यसभा प्रवर्तमानवर्षीयम् अन्ताराष्ट्रिय सेवाकेन्द्र प्राधिकरण विधेयक गतदिवसे राज्यसभया अनुमोदितम् लोकसभया विधेयकमिदं प्रागेव अभ्युपगतम् आसीत् विधेयकस्य उद्देश्यं भारते अन्ताराष्ट्रिय वित्तीय सेवा केन्द्रेषु वित्तीय सेवा विपणे विकासाय विनियमनस्य च कृते एकीकृत प्राधिकरणस्य प्रतिष्ठापनं विद्यते

झारखण्डविधानसभा झारखण्डे विधानसभा निर्वाचनानाम् अवशिष्टस्य चरणद्रयस्य कृते प्रचाराभियानानि सजवं प्रवर्तन्ते एतच्चारणान्तर्गतं कोयलांचल संथाल परगना जनपदयो एकत्रिंशत् निर्वाचनक्षेत्रेष् मतदानानि अनुष्ठास्यन्ते